विधानसभा निर्वाचनानि महाराष्ट्रे हरियाणायां च विधानसभा निर्वाचनार्थं श्वो भाविने मतदानाय सम्प्रति सकलाः प्राक् सज्जाः प्रपूरिताः महाराष्ट्रे अष्टाशीत्यधिकानि द्विशतं हरियाणायां च नवतिः निर्वाचन क्षेत्राणि मतदानं संम्खी करिष्यन्ति राज्य द्वयेऽस्मिन् मतदानैः सममेव लोकसभासन य्गलाय सप्तदश राज्यानाम् एक पञ्चाशद विधानसभासनेभ्यश्चापि मतदानानि भवितारः सकलैः अप्यैतैः मतदानैः सम्बदधाः मतगणनाः ग्रुवासरे निष्पादयिष्यन्ते उभयत्रापि प्रदेशायोः विधानसभा निर्वाचनार्थ विभिन्नानां राजनैतिक वृन्दानां धन प्रचाराभियानानि गतसायं सम्पन्नतां गतानि प्रधानमंत्री प्रधानमन्त्री श्रीनरेन्द्रमोदी मनोरञ्जनजगतो जनान् समाहवयत् यते राष्ट्र निर्माणाय जनेष् सर्जनाशक्तिं जागरयेय्ः

राष्ट्रपतिः श्रीरामनाथकोविंदः फिलीपींसदेशस्य राष्ट्रपतिः रोड्रिगो ड्यूटेर्ट च द्वयोर्देशयोर्मध्ये भविष्यत्काले स्दृढ़ सहयोगाय आशां प्रकटितवन्तौ विदेशमन्त्रालयस्य प्रवक्ता रवीशक्मारः ट्वीट सन्देशे अवादीत् यत् राष्ट्रपतिः इ्यूटेर्टे भारत प्रशांत क्षेत्रे भारतस्य महतीं भूमिकां स्वीकृतवान्